प्रधानमन्त्री नरेन्द्रमोदी अद्य राष्ट्रियं मापविज्ञानसम्मेलनं उदघाटयत् पर्यावरणमानक प्रयोग शालायाआधारशिला चापि अमुना स्थापिता

देशे कोरोना महामारीत स्वस्थीभूतानां प्रतिशतता षण्णवतिदशमलव एकनवमिता सम्वृत्ता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

प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम् यत् गुणवत्ता विश्वसनीयता च भारतीयोत्पादानाम् आधारस्तम्भौ भवितव्ये दृश्यांकन माध्यमेन राष्ट्रिय माप विज्ञान सम्मेलनस्य उद्घाटनासत्रं सम्बोधयन् श्री मोदी अवोचत् यत् भारतीय वैज्ञानिकै प्रौद्योगिकी बलेन कोरोना संक्रमणं निराकर्त् सुच्यौषधद्वयं विनिर्मितमं सममेव उक्तं यत् न केवलं भारते अपित् जगति शीघ्रमेव सूच्यौषध प्रदानाभियानं प्रारप्स्यते इदं हि जगत बृहत्तमं सूच्यौषधाभियानं वर्तते

माप विज्ञान विषये अमुनोक्तं यत् अनेन जगति अस्माकं उत्पादनानां विश्वसनीयता संवर्धयिष्यति अध्ना न केवलं भारते निर्मितानां वस्तूनां अभियाचन संवर्धनस्य आवश्यकता विद्यते अपित् स्वीकृतेरावश्यकता अस्ति प्रधानमन्त्रिणा प्रतिपादितं यत् भारतीय निर्देशक द्रव्याणि राष्ट्रे गणपूर्णोत्यादानां निर्माणे साहाय्यं उपपादयिष्यति श्री मोदिना प्रोक्त यत् राष्ट्र उद्योगोन्मुख दृष्टिकोणात् उपभोक्त आश्रित दृष्टिकोणं प्रति अग्रेसरति अत्रावसरे प्रधानमन्त्रिणा राष्ट्रिय परमाण् समयमापकम् अथ च भारतीयनिर्देशक द्रव्यमपि राष्ट्रायार्पितम्

अस्मिन अवसरे विज्ञान प्रौद्योगिकी मन्त्री डॉ् हर्षवर्धन वैज्ञानिकौद्योगिक अनुसन्धान परिषदे महानिदेशक शेखरमाण्डे केन्द्रप्रशासनस्य वैज्ञानिक परमर्शद प्रो् विजय राघवनश्च उपास्थिता अवर्तन्त नायडु उपराष्ट्रपति एम वैंकेयानायड् कोविड सूच्यौषधद्वयस्य आपत्प्रयोगान्मतिं प्रशंसितवान् प्रोक्तं यत् भारतस्य वैज्ञानिकविकास सृच्यौषधोद्वोषणया साकम् आत्मनिर्भरभारतस्य सफलतां द्योतयति न केवलं भारताय प्रत्यृत मानवतायै हितप्रदोयं पदक्रम भविष्यति कृषक प्रशासनस्य कृषक संघटनानां च मध्ये सप्तमस्तरीया वार्ता अद्य राजधान्यां नवदिल्लयाम प्रवर्तते उपवेशने केन्द्रीय कृषि मन्त्री नरेन्द्र सिंह तोमर रेलमन्त्री पीयूषगोयल कृषकसंघटनानां नेतारश्च उपस्थिता सन्ति अस्मिन् उपवेशने नृतन कृषि विधित्रयमालक्ष्य परिचर्चा विधीयते उपवेशनात् प्राक् कृषिमन्त्री प्रावोचत् यत् प्रशासनं कृषकाणां समस्या समाधात् प्रतिबद्धम विद्यते

सम्प्रति स्वास्थ्य लाभ प्राप्तवतां प्रतिशतता षणवति दशमलव एकम नव मिता संवृत्ता विगते अहोरात्रे नवदश सहस्रं जना संक्रमणात् विमुक्ता अभवन् स्वास्थ्य मन्त्रालयानुसारेण इदानीं यावत् षड् चत्वार्रिशत् सहस्रोत्तर नवनवति लक्षमिता संक्रमितजना आरोग्यं प्राप्तवन्त भारते कोविड संक्रमणात् मृत्युमिति प्रतिशतम् एकदशमलव चत्वारि पञ्चमिता विद्यते भारतीय आयुर्विज्ञानअनुसंधान परिषदा प्रोक्तं यत् गतदिने पंचत्रिंशत् सहस्रोत्तर सप्तलक्षाधिक परीक्षणानि विहितानि स्वास्थ्यमन्त्रालय स्वास्थ्य मन्त्रालयेन प्रोक्तं यत् भारते कोविड संक्रमणस्य नूतन प्रकारे अष्टरिंशत् सक्रिय प्रकरणानि दृष्टिपथमागतानि सक्रिय प्रकरणानि दश प्रयोगशालासु निरीक्षणधिकृतानि सन्ति एते संक्रमित जना पृथक् पृथक् कक्षेषु एकान्तवासाय स्थापिता सन्ति राज्यप्रशासनै स्वास्थ्य केन्द्रेष् एतेषां कृते व्यवस्था कृतास्ति तेषां सम्पर्के समागत जना अपि एकान्तवासे स्थात्ं निर्दिष्टा जावड़ेकर सूचना प्रसारणमन्त्री प्रकाश जावड़ेकर समसूचयत् यत् प्रशासनेन सर्वे मन्त्रिण विभागाश्च प्रोदीरिता यत् ते व्यक्तिगत विवरण प्रपत्राणां संरक्षणाय डिजिलॉकर इति अंकीय संरक्षण संप्रहस्य प्रयोगं कुर्वन्त् ट्वीट् सन्देश माध्यमेन श्री जावड़ेकर प्रत्यपादयत् यत् प्रशासनं मिनिमम गवर्नमेन्ट मैक्सिमम गवर्नेंस इति न्यूनतम प्रशासनम् अधिकतम शासनविधीत्याख्यं निज निर्धारित लक्ष्यं प्रति उन्म्खं विद्यते एतद्देश्यं नागरिकेभ्य विना व्यवधानं वस्तु आपूर्ति सेवा सौविध्यस्य प्रदानम् अस्ति बिहारम् बिहारे अद्य प्रभृति उच्चमाध्यमिकस्तरीयाणि महाविद्यालय समानानि च सकलान्यपि शिक्षण संस्थानानि समुद्धटितानि प्रशासनानुसारि अत्र कोरोना सम्बद्धा दिनिर्देशा काठोयेंण परिपालयिष्यन्ते सममेव कक्षास् पञ्चाशत् प्रतिशतं छात्रा एव अनुमता सन्ति

त्रयोपि इमे निगडीकृता घटनास्थले उच्चपदं सन्धारयन्ति एतदतिरिच्य प्रकरणे संलिप्तान् पञ्चजनान् विरूद्वय गतदिने प्राथमिकी अपि पंजीकृतासीत् तावत् उक्त दर्घटनायां मृत्युम्पगतानां संख्या आहत्य पंचविंशति संवृत्ता त्रयोदश जनाश्च चिकित्सालयेष् उपचर्यमाणा सन्ति दःखास्पदा घटनेयं गतदिने मुरादनगरस्य श्मशानस्थले दुरापादिता अवर्तत भारतम् भारतेन अथ एडीबी इति एशियन डेवलेप्मेन्ट बैंक इत्यनेन च सम्मिल्य शत मिलियन डॉलर मुद्रात्यकस्य एकं ऋण युतं पत्रं हस्ताक्षरितम् एतस्य ऋण परस्य धनराशे प्रयोग बैंगलुरू नगरे विद्युत्वितरण प्रणाल्या अतोपि आधुनिकीकरणे विधास्यते जयशंकर विदेशमन्त्री डॉ एस् जयशंकर श्व प्रभृति त्रि दिवस व्यापिन्यै यात्रायै श्रीलंका प्रस्थास्यति अत्रान्तरे असौ श्रीलंकाया स्वीय समकक्षेण अथ अन्यै वरिष्ठ मन्त्रिभिश्च साकं द्विपक्षीय विषयेष् चर्चा करिष्यति प्रवर्तमानवर्षस्य प्रथमेयं यात्रा विदेशमन्त्रिणो विद्यते यात्राया उद्देश्यं उभयो देशयोर्मध्ये सम्बन्धस्य दृढीकरणाम् अस्ति